गृहमन्त्रिणा अमित शाहेन गांधीनगरे अपराधानाम् अपकरणाय देशस्य प्रथम एकांश आश्वस्त इति समुद्धाटित

प्रधानमन्त्री कोलकाता प्रधानमन्त्री नरेन्द्रमोदी अद्य द्वि दिवसीय यात्रा प्रसंगे कोलकातां सम्प्राप्यते असौ अद्य अपराह्वानन्तरम् ओल्ड करेंसी भवने प्रदर्शन्या कला दीर्घानां समुद्घाटनं विधास्यति प्रधानमन्त्री श्रीमोदी कोलकाता पत्तन न्यासस्य स्थापनाया साधैंक वर्षपूर्त्यवसरे समायोजितस्य कार्यक्रमस्य उद्घाटनमपि करिष्यति श्री मोदी अद्य रात्रौ बेलूर मठ राम कृष्ण मठ मिशनस्य यात्रामपि विधास्यति अमित शाह केन्द्रीय गृहमन्त्रिणा अमित शाहेनाद्य प्रात गांधीनगरे महात्मा मन्दिरे गुजरात आरक्षिदलस्य विभिन्न जनहित परियोजना उद्घाटिता अवसरेऽस्मिन् श्री अमितशाहेन विधि व्यवस्थां नियन्त्रयित्ं प्रविधि महत्वं प्रबलं व्याहृतमु तेनोक्तं यत् राज्ये अपराधानां निरस्तीकरणाय विश्वास परियोजना अथ च आश्वस्त परियोजना महत्वपूर्णां भूमिकां निर्वाहयिष्यत तेन गुजरातस्य विभिन्न लोकनृत्य प्रदर्शनमन् षड् डाक स्मरण पत्रमपि समुद्घाटितम् तेन गांधीनगर रेल स्थात्रे निशुल्क वाई फाई प्रणाली अपि राष्ट्राय समर्पितास्ति श्री शाह अद्य तृतीये प्रहरे गांधीनगरे ग़जरात प्रविधि विश्वविद्यालयस्य नवमे दीक्षान्त समारोहेऽपि भागं निर्वाहयिष्यति सायंकाले च असौ नारनप्र विधानसभा क्षेत्रस्य विभिन्न समितिनाम् अध्यक्षा सचिवा च संबोधयिष्यति सेना प्रमुख सेना प्रमुखेण जनरल मनोज मुकंद नरवणे प्रोक्तं यत् चीफ ऑफ डिफेंस स्टॉफ सैन्य विभागस्य स्थापना च एकीकरण दिशायां महत्वपूर्णा उपाया सन्ति नवदिल्ल्यामद्य वार्ताहरै सम्भाषणे तेनोक्तं यत् भारतीय सेना पदक्षेपस्यास्य सफलताम्प्रति पूर्णतया आश्वस्तास्ति तेन प्रोक्तं यत् भारतीय सेना पूर्णरूपेण सक्षमा विद्यते तेनाश्वासनं प्रदत्तं यत् सैनिकेभ्य सर्वोत्तम सुविधा प्रदास्यन्ति आकांक्षा अपि पूर्णरयिष्यन्ति तेनोदीरितं यत् अशेष जम्म् कश्मीरं भारतस्य अभिन्नांग रूपे संसदीय प्रदस्ताव रूपे च स्वीकृतम् यूएई सम्वेदना राष्ट्रपतिना प्रधानमन्त्रिणा च सुल्तान कबूस बिन सईद अल सईदस्य निधने गंभीरं दुखं प्रकटितम् शाही दरबार पक्षत प्राशासनिक ओमान वार्ताभिकरणेन सुल्तानस्य निधनं प्रकाशितम् ऊनाशीति वर्षीय सुल्तान गत वर्षात् रूग्ण आसीत् तस्य निधने त्रि दिवसीय प्राशासनिक शोक घोषित ईरान विमानम् ईरान देशेन प्रतिपादितं यत् तस्य सैन्य दलेन युक्रेनस्य विमानमेकं अनभिज्ञतावशात् ध्वस्ती कृतम् दर्घटनायां शताधिक षडसप्तति यात्रिण समेत्य चालक दलस्य सदस्यानां द्खद मृत्यु सञ्जातास्ति कांग्रेसदलम् कांप्रेस दलेनाद्य प्रशासनं जम्मू कश्मीरे पुञ्छ जनपदे पाकिस्तानीय सेनया मारितयो बलभटयो प्रकरणे आक्षिप्तम् कांग्रेसदलस्य प्रमुख प्रवक्त्रा रणदीप स्रजेवाला आरोपितं यत् प्रधानमन्त्री रक्षामन्त्री राजनाथ सिंहश्च देशस्य स्थित्यां विषये तृष्णीं स्त उत्तरप्रदेश उत्तरप्रदेशस्य मुख्यमन्त्रिणा योगी आदित्यनाथेनोक्तं यत् राज्य प्रशासनेन पारम्परिक उद्योगानां स्वदेशी कौशलं च विवर्धित् एक जनपद एक उत्पाद ओडीओपी इति योजना प्रारब्धा अद्य लखनऊ नगरे कौशल स्थलस्य उद्घाटनावसरे मुख्यमन्त्रिणोक्तं यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना पारम्परिक उद्योग सौकर्यर्थं सुदृढीकर्त् च मञ्चमेक सुसज्जीकृतम् प्रधानमन्त्री प्रधानमन्त्रिण विद्यालयीय छात्रै सम्भाषणस्य तृतीय संस्करणं परीक्षा पे चर्चा प्रवर्तमानवर्षाय नवदिल्ल्या तालकटोरा प्रांगणे जनवरी विंशे आयोजयिष्यते अस्मिन् कार्यक्रमे अशेष देशस्य द्वि सहस्राधिक विद्यार्थी शिक्षक अभिभावका च भागं निर्वाहयिष्यन्ति